संक्रमणात् स्वात्मानं संरक्षित्ं आवश्यकानाम् उपायानाम् अनुपालनार्थम् अमुना जना अध्यर्थिता

रूजा पीडितानां संख्या आहत्य देशे त्रि सप्तति जाता

उक्तं कोरोना संक्रमणं नास्ति भयावहम् प्रत्युत संक्रमणात् स्वात्मानं संरक्षित्ं आवश्यका उपाया अनिवार्यत्वेन अन्पालनार्थम् अमुना जना अध्यर्थिता ट्वीट् सन्देश माध्यमेन प्रधानमन्त्री वक्तव्यमिदं प्राकाशयत्

रूजा पीडितानां संख्या आहत्य देशे त्रि सप्तति जाता केन्द्रीय स्वास्थ्य मन्त्रिणा डॉ हर्ष वर्धनेन कोरोना विषाणो प्रकोपं नियन्तुं प्रशासनेन विहिता विभिन्ना पदक्रमा विज्ञापिता असौ अद्य सन्दर्भेंऽस्मिन लोकसभायाम अभिभाषते स्म स्वास्थ्यमन्त्री समसृचयत् यत् साम्प्रतं विदेशेभ्य समागतानां समेषयमपि विमान यात्रिणां चिकित्सकीयं परीक्षणं त्रिशत् विमानपत्तनेष् विधीयते स्थितिरस्ति नियन्त्रणाधीना

विदेशमन्त्री विदेशमन्त्री एस जयशंकर लोकसभायामद्य व्यज्ञापयत् यत् प्राय षट् सहस्रं भारतीय नागरिका साम्प्रतं ईरानस्य विभिन्नेष् प्रान्तेष् निवसन्ति एतेष् एकादश शतं लद्दाख जम्मुकश्मीर महाराष्ट्र राज्यवासिन श्रद्धालव सन्ति त्रि शतं छात्रा जम्मुकश्मीरस्य अपि च तमिलनाड़ केरल ग्जरात प्रान्तानां सहस्रं धीवरास्तत्र वसन्ति अम्ना समाश्वासितम् यत् छात्रान् ईरानत भारतं प्रत्यानेत् प्रशासनं सजवं कार्याणि कुरूते एतदतिरिच्य विदेशमन्त्री अचकथत् यत् संक्रमणस्य विवर्धमानं दुष्प्रभावं निधाय प्रशासनेन अद्य प्रभृति वीजा ति पार गमनान्मति पत्र व्यवस्था स्थगित स्थगन निर्णयोड़यं सम्प्रति अप्रैल पञ्चदश दिनांकं यावत प्रवर्तिष्यते स्वास्थ्यमन्त्रालय स्वास्थ्य मन्त्रालयेन कोरोना संक्रमणेन पीडितानां पृथग् व्यवस्थामवलम्ब्य निर्देशा प्रख्यापिता

गवाक्षय्क्तं च तत्प्रकोष्ठ अनिवार्यम् समुदीरितम्

एतत्संघटनस्य प्रमुख टेडरोस् अधनॉम् िक्विसौ जेनेवायां अद्य वार्ताभिकरणै सार्थं संवाद प्रसंगे संक्रमणस्य द्रतगत्या विवर्धमान प्रकोप चिन्ताजनक प्रख्यापित

राज्यसभा ऐषम वित्तीय संस्थानानां संपद्विहीनता धनाशोधना क्षमता संहिता संशोधन विधेयकम् खनिज संशोधन विधेयकम् चाद्य राज्यसभया अभ्यूपगते विधेयकमिदं लोकसभया प्रागेव अन्मोदितम् आसीत् राज्यसभायां विषयेऽस्मिन् प्रत्युत्तरन्ती वित्तमन्त्री निर्मला सीतामरण सबलं प्रत्यपादयत् यत् केन्द्रप्रशासनं सदैव परिवर्तमानं परिस्थित्यन्ग्णं निर्णय विधानार्थं वचनबद्धमस्ति

तत्रैव नूतनत्वेन भाजपादलं प्रविष्ट ज्योतिरादित्य सिन्धिया अद्य भोपालं सम्प्राप्त असौ राज्यसभा निर्वाचनाय निज नामांकन पत्रम् श्व पूर्यिष्यति तत्रैव सिन्धिया समर्थकाणां समेषामपि विधायकानां कांप्रेस् दलान्निष्कासनं सुनिश्चेतुं मध्यप्रदेशस्य मुख्यमन्त्रिणा कमलनाथेन लिखित पत्रे राज्यपाल अध्यर्थित